प्रधानमन्त्री श्रीनरेन्द्रमोदी उत्तरप्रदेशे विभिन्ना ग्रामीण पेयजलापूर्ति परियोजना न्यस्तवान् तेन प्रोक्तं विन्ध्याचल बुन्देलखण्डयो प्रत्येकं जन शीघ्रमेव पेयजलं अवाप्स्यति इति

एटीपी फाइनल्स् इति टेनिस् स्पर्धामालिकायां राफेल नडाल् नोवाक योकोविच् पराभूतौ

प्रधानमन्त्रिणा मोदिना अवसरेऽस्मिन् ग्रामीण जल स्वच्छता समिते सदस्यै साकं वार्ता अपि सम्पादिता प्रधानमन्त्रिणा प्रोक्तं यत् उत्तरप्रदेशे आभि योजनाभि हर घर नल जल परियोजनायां प्रगति भविता सममेव प्रधानमन्त्रिणा विन्ध्याचल क्षेत्रे त्रयोविंशति जलपेय परियोजनानां आधारशिला संस्थापिता प्रधानमन्त्री मोदी अवादीत् यत् इयं परियोजना न केवलं शुद्धं जलं प्रापयिष्यति अपित् बहून् रोगानपि अपवारयिष्यति इति प्रधानमन्त्रिणा स्पष्टीकृतं यत् स्वतन्त्रता अवाप्त्यानन्तरं कमपि एकं क्षेत्र उपेक्षितं आसीत् तत् वर्तते इदं क्षेत्रम् तेन प्रोक्तं आगामि काले यदा पञ्चत्रिंशत् शतं ग्रामा जलापूर्ति परियोजनया अनया लाभान्विता भविष्यन्ति तदा चत्वारिंशत् लक्ष जनानां जीवनं परिवर्तथिष्यते इति तेन स्पष्टीकृतं यत् अनेन लक्षश जना स्वीय गृहे जलं अवाप्स्यन्ते इति संसाधनानां सत्यपि विन्ध्याचलं भवतु वा बुन्देलखण्डं इमे क्षेत्रे नैयून्य क्षेत्रे सम्वृत्ते श्रीमोदी अवादीत् यत् हर घर जल इति परियोजनाया एकं वर्ष व्यतीते सति षष्टिलक्षाधिक द्विकोटि परिवारेभ्य तत् तत् गृहेष् पेयजल सौविध्यम् सुलभायितम् अवधेयास्पदं तथ्यमिदं यत् प्रतिशतं त्रीणि अष्ट दशमलवोत्तर पञ्चपञ्चाशत् उत्तर पञ्चशताधिक पञ्चसहस्रं कोटि रूप्यकात्मकाभि आभि योजनाभि तत्रत्य द्विचत्तवारिंशत् लक्षजना स्वच्छ जलं प्राप्नुवन्ति कोविड नेशनल अपडेट कोरोना इति वैश्विक संक्रमणं विरुध्य अखिलेऽपि देशे निर्णायकं युद्धं प्रवर्ततेतराम् साम्प्रतं देशे पञ्चचत्वारिंशत् सहस्राधिक नूतन प्रकरणै साकं देशे सप्ताधिक अष्टशतोत्तर पञ्चनवति सहस्रोत्तर नवति लक्षप्रकरणानि वर्तन्ते येष् सपाद पञ्चाशीति लक्षाधिका जना स्वस्थताङ्गता विगते अहोरात्रे एकाधिक पञ्चशतं जना अनेन मृत्युम् उपेता देशे प्राय चत्वारिंशत् सहस्रोत्तर चतुरलक्ष सक्रिय प्रकरणानि वर्तन्ते दिल्ली कोविड देशस्य राजधान्यां दिल्ल्यां कोविडमहामारी संक्रमण तीव्रतां दृष्टिपथं निधाय केन्द्रप्रशासनस्य राज्यप्रशासनस्य च शासकीय इतरप्रशासकीय चिकित्सालयेषु पञ्चोत्तरद्विशतं गहनचिकित्सा विभागे रूग्ण शय्यासु वृद्धिः कृता गृहमन्त्रालयेणोक्तं यत् केन्द्रप्रशासनस्य चिकित्सालयेषु दिल्ली स्थिते अखिल भारतीययुर्विज्ञानसंस्थाने ऑक्सीजन सुविधापूर्णा शय्यानां संख्यासु अपि षोडशाधिक एकशतमितस्य विवर्धनं जातम् सेन्ट्रल टीम्स केन्द्रप्रशासन् हिमाचल प्रदेश पञ्जाब उत्तर प्रदेश चेति राज्येषु कोविड प्रवन्धनाय उच्चस्तरीय दलानि सम्प्रेषयत् ध्यानास्पदं तथ्यमिदं यत् एतेषु राज्येषु कोरोना इति वैश्विक संक्रमणस्य प्रकरणानि तीव्रगत्या उपचीयन्ते इति त्रिसदस्यात्मकं केन्द्रीय दल संक्रमणग्रस्त क्षेत्राणां निरीक्षणं विधास्यति इति इमानि दलानि संक्रमणम् अवरोद्ध निरीक्षणं प्रतिदर्शपरीक्षणं संक्रमणप्रस्त रोगिभ्य उपचार्यमाणावधौ चिकित्सासौविध्यं चेति विषयेष राज्येभ्य सहयोगं उपपादयिष्यन्ति इति केन्द्रीय दलानि इमानि संक्रमणात् स्वास्थ्यलाभं प्राप्तवतां जनानां निरीक्षणं अवधानता विषये अपि परामशैं करिष्यन्ति अवधेयास्पदं तथ्यमिदं यत् इत प्राक् हरियाणा राजस्थान ग्जरात मणिप्र छत्तीसगढ चेति राज्येष्वपि एतादृशानि उच्चस्तरीय केन्द्रीय दलानि सम्प्रेषितानि सन्ति

निशंक अवार्ड देशस्य केन्द्रीय शिक्षामन्त्रि डॉ रमेश पोखरियाल निशंकाय ह्य ब्रिटेनस्य प्रतिष्ठित संस्थाद्वारा वातायन शिखर सम्मान सम्पायनीकृत सम्मानोऽयं डॉ पोखरियालाय तस्य साहित्यिक विशिष्टोपलब्धये दृश्य श्रव्य अन्तर्जालीय माध्यमे समायोजितानृष्ठाने वितरित डॉ पोखरियालस्य साहित्य सर्जन संसार विशालतम वर्तते अस्य साहित्यस्य पञ्च दशाधिकास् वैदेशिक भाषास् अपि जातोऽस्ति अनुवाद सम्मान ग्रहणात परं अमुना न्यगादि यत् तस्य साहित्यिक रचनासु राष्ट्रप्रेम संघर्ष समर्पणम् संकल्पश्चेति मानव समाजोत्थानपरा संवेदनशीला कोमला भावना सन्ति प्रस्फुटीकता मुलायम सिंह प्रधानमंत्री नरेन्द्र मोदी अद्य समाजवादी पार्टीति दलस्य नेता मुलायम सिंह यादवेन सह वातीं कृतवान् एवञ्च तस्मै जनिदिनावसरे वर्धापनानि प्रदत्तानि स्वीय ट्वीटालेखे श्री मोदिना उक्त यत् मुलायम सिंह यादव देशस्य वरिष्ठतम अनुभवी नेता च अस्ति येन कृषि ग्रामीण विकासस्य क्षेत्रेष् बहनि कार्याणि सम्पादितानि चेन्नई रिजर्वोयर सर्वेष् प्रमुख जलाशयेष् ये चेन्नई नगरस्य जल आवश्यकतां सम्प्रयन्ति तेष् जलाशयेष् अतिवृष्टिकारणात् जलं उपचीयते सममेव केन्द्रीयगृहमन्त्रिणा अमितशाहेन द्य तिरूवल्ल्र जनपदस्य प्रतिवेशि थरवोई कंदिगई ग्रामे नव जलाशय उपायनीकृत एटीपी फाइनल्स एटीपी फाइनल्स् इति व्यावसायिक टेनिस संघ स्पर्धामालिकाया निर्णायक चक्रे अद्य विश्वस्य तृतीय मानाड़कधारक डोमिनिक थियेम इत्येनं अपि च डेनिल मेदवेदेव इत्येनं च अन्तरा निर्णायक स्पर्धा स्पर्धते आस्ट्रिया देशीय थियेम् इत्यसौ लंदन नगरे विश्वस्य प्रथम मानाङ्कधारकं नोवाक् योकोविच् इत्येनं पराभूय द्वितीयवारं निर्णायकचक्रं प्रविष्टोऽस्ति अपरत रूसदेशीय डेनिल् मेदवेदेव् इत्यसौ विंशातिवारं प्रैण्डस्लैम विजेतारं राफेल नडाल इत्येनं पराभूय निर्णायकचक्रे स्थानं समधिगच्छत् इति